एतदर्थं निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्त्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

स्वसंसदीय क्षेत्रे प्रधानमन्त्रिणा प्रोक्तं यत् संक्रमितानां जनानां सम्पर्के आगतानां जनानां शीघ्रमेव अभिज्ञानं कृत्वा परीक्षण प्रतिवेदनं दीयताम क्वि राज्य केन्द्रीय सर्वकारेण प्रतिपादितं यत् गमनागमनेष् प्रवर्तितैः प्रतिबन्धनैः सूच्यौषधीकरणे अवरोधः न भवेत् केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्रालयस्य अपर सचिवेन डाक्टर मनोहर अगनानी इत्यमुना राज्येभ्यो केन्द्रशासित प्रदेशेभ्यो च लिखिते एकस्मिन् पत्रे प्रतिपादितं यत् कोविड सूच्यौषध केन्द्रेष् सूच्यौषधीकरणं निर्वाधरूपेण प्रवर्तेत सममेव सूच्यौषधाभियान केन्द्राणि पृथक् भवने स्थाने वा भवेय्ः येन सूच्यौषधेन लाभार्थिभ्यो जनेभ्यो संक्रमण न भवेत कडि क्सीजन केन्द्र सर्वकारेण प्रोक्त यत् राज्यैः केन्द्रशासित प्रदेशैश्च प्राणवायोः आक्सीजन इत्यस्य औद्योगिक प्रयोगस्य प्रतिषेधं कर्त् आवश्यकं कार्य करणीयम् केन्द्रीय गृह सचिवेन अजय भल्ला इत्यम्ना लिखिते एकस्मिन् पत्रे संसूचितं यत् अयं निर्णयः राज्येष् कोरोना रूजया गभीररूपेण पीडितानां जनानां उपचारे प्राणवायोः अभ्यर्थनायां वृद्धिम् अभिलक्ष्य गृहीतः अवधेयास्पदम् अस्ति यत् केन्द्रीय सर्वकारेण पूर्वे एव अप्रैल मासस्य द्वादशदिनांकतः प्राणवायोः औद्योगिक उद्देशेन आपूर्तिः प्रतिषिद्धिकृता आसीत्

अनेन प्राणवायोः अल्पतया कोरोनातः गभीररूपेण पीडितानाम् उपचारे सौविध्यं भविष्यति गोयल कोविड केन्द्रीय रेल वाणिज्य मन्त्री पीयूष गोयलः प्रोक्तवान यत् कोविड संक्रमणं रोद्ध केन्द्रीय सर्वकाैः अहर्निशं राज्यानां साहाय्यं क्रियन्ते अनेनैव अयं निर्णयः गृहीतः यत् प्राणवायोः वाहक ट्रकयानानां रेलमाध्यमेन परिवहनस्य अनुमतिः प्रदत्ता सममेव राज्येभ्यो प्राणवायोः आपूर्ति द्रतगत्या सुनिश्चीकर्तम् एव हरित क्षद्वित्य निर्माण क्रियते

अस्मिन् पञ्चशतं शय्याः भविष्यन्ति केन्द्रीय स्वास्थ्य मन्त्री डॉ हर्षवर्धनः प्रोक्तंवान् यत् अद्य प्रभृतिः पञ्चाशदधिक द्विशतं शय्याः प्रयोगार्थं सिध्दाः सन्ति

तत्रैव एकस्याम् अन्यस्यां स्पर्धायां दिल्ली कैपिटल्स इति दलेन पंजाब किंग्स इत्येतद् दलं षड्क्रीडकै पराजितम् श्रृंखलायाम् अद्य चेन्नई सुपरकिंग्स राजस्थान रॉयल्स दलयोर्मध्ये प्रतिस्पर्धा भविष्यति